प्रधानमंत्री प्रधानमन्त्रिणा नरेन्द्र मोदिनोदीरितं यत् महात्म गांधिन शिक्षया विश्वस्य समक्षे समास्यानां समाधाननि भवितृमर्हन्ति स हय अहमदाबादस्थे एक विमानस्थात्रं सम्बोधयति स्म मोदिना भणितं यत् वैश्विक स्तरे भारतस्य स्थिति वर्धिता सकारात्मकानां परिवर्तनानां क्षेत्रेष् भारतम् अग्रगण्यम् अस्ति प्रधानमन्त्री साबरमत्याश्रमम् अगच्छत् महात्म गांधिने च श्रद्धांव्जलिमं अर्पितवान् अपि च भारत देशम् मुक्त शोचान्मुक्त घोषितवान् मोदिना प्रोक्तं यत् पर्यावरणाय अभिघट्ट पदार्थ भयावह अस्ति द्वाविंशत्युत्तर द्विसहम्र ख्रिष्टाब्द पर्यन्तं एकल प्रयुज्यामानेभ्य अभिघट्ट पदार्थेभ्यमुक्त देश भवेत् एतत् लक्ष्यम् अस्ति मोदिना जल संरक्षणाय प्रारब्धस्य जल जीवन मिशन इत्यस्य विषये जना आग्रहिता यत् ते जलम्रोतसां पुनर्भरण स्तरे स्थानीय स्तरे जलस्य पुन प्रयोगाय अभियानेन सम्बद्धा भवेयु प्रधानमन्त्रिणा राष्ट्रपितृ महात्म गांधिन साधैंकशततम्यां जयन्त्यां साधैंकशतरूप्यकस्य मुद्रा स्मारक डाक अभिज्ञानपत्रं च प्रचालितम् बिहारम्जलौघ ऋत्विभागेन बिहारप्रदेशस्य पटना वैशाली बेगुसराय खगड़िया जनपदेष् आगामि अष्टचत्वारिंशत् होरा पर्यन्तं अतिवृष्टे संचेतना प्रसारिता पटना प्रशासनेन आदिष्टम् यत् द्वाभ्याम् दिवसाभ्यां सर्वाणि शैक्षणिकानि संस्थानानि पिहितानि स्यू पुनपुन गंगा सोन बागमती कोसी नदीनां जलस्तर सततं वर्धते अत एतानि क्षेत्राणि जलै मग्नानि राज्ये इंदानी जलप्लावेन एकषाष्टि जना मृता

माल्दा मुर्शीदाबाद हावड़ा हुबली जनपदेष् जलौघस्य स्थिति दृश्यते वन्देभारत रेलयानम् गृहमन्त्री अमित शाह अद्य दिल्ली कटरा वन्दे भारत एक्सप्रेस रेलयानस्य हरित ध्वजं प्रदर्श्य प्रारम्भं करिष्यति

राष्ट्रपति पुरस्कार राष्ट्रपति रामनाथ कोविंद वृद्धान् जनान् तेषां सेवया युक्तानि संस्थानानि च सम्मानयितुं अद्य नवदशोतर द्विसहस्रतम खिष्टाब्दस्य वयोश्रेष्ठ सम्मानं प्रदास्यति